अद्य प्रधानमन्त्री कोरोना संक्रमणस्य नूतनानि प्रकरणानि सममेव कोविड सूच्यौषधाभियानम् अभिलक्ष्य सर्वेषां राज्यानां म्ख्यमन्त्रिभि साकं समीक्षा मंत्रणां विधास्यति देशे गतचतुर्विशति होरासु कोरोना संक्रमणस्य प्राय षड्विंशति सहस्राधिक एक लक्षं नूतन प्रकरणानि पंजीकृतानि देशे साम्प्रतं यावत् नवकोटितोप्यधिकानि कोविड सूच्यौषधानि जनेभ्य वितरितानि सन्ति पश्चिम बंगाल विधानसभा निर्वाचनोपक्रमे चत्र्थचरणस्य मतदानाय निर्वाचन प्रचार अद्य सायं समाप्तो जात सैन्य प्रमुख जनरल मनोज मुक्न्दनरवणे बांगलादेशस्य स्वीय पंच दिवसीय यात्रायाम् अद्य बांग्लादेशं प्राप्नोत्

प्रधानमन्त्रिणा अस्य विषये ट्वीट माध्यमेन संसूचितम् असौ प्रत्यापदयत् यत् कोविड सूच्यौषधं संक्रमणस्य अपचीय क्षेत्रेष् प्रम्खं स्थानं भजते प्रधानमन्त्रिणा स्वीयसंदेश सूच्यौषधग्रहणार्थ सर्वे पात्रजना समाहताश्चापि प्रधानमन्त्री उपवेशनम् प्रधानमन्त्री नरेन्द्रमोदी अद्य कोरोना संक्रमणस्य नूतनानि प्रकरणानि सममेव कोविड सूच्यौषधाभियानम् अभिलक्ष्य अदय सर्वेषां राज्यानां मुख्यमंत्रिभि साकं समीक्षा मंत्रणां विधास्यति एतत् मंत्रणोपवेशनं कोरोनासंक्रमणस्य अशेषे हि देशे तीव्रगत्या संवर्धितप्रकरणानि निध्याय समाहतं वर्तते दृश्यश्रव्यपरान्तर्जालीय माध्यमेन समायोज्यमाने अस्मिन् उपवेशने प्रधानमन्त्री श्रीमोदी सूच्यौषधाभियानम् अभिलक्ष्य विस्तरेण चर्चा विधास्यति एतत्पूर्व मार्चमासस्य सप्तदशे दिनांके प्रधानमन्त्रिणा मुख्यमंत्रिभि सार्ध चर्चा समन्ष्ठिता आसीत् प्रधानमन्त्रिणा देशस्य विभिन्न क्षेत्रेष् कोविडसंक्रमणस्य संवर्दधित प्रकरणेष् गभीरा चिन्ता प्रकटिता एवंच कोविड संक्रमणस्य अस्य द्वितीयझंझावातोपरि नियन्त्रणाय त्वरितत्वेन निर्णायकपदक्षेपग्रहणार्थ सर्वे जना समाहताश्चपि प्रधानमन्त्री नीदरबैण्ड प्रधानमन्त्री नरेन्द्रमोदी श्व दृश्यक्षव्यपरान्तर्जालीय माध्यमेन नीदरलैण्डदेशीय प्रधानमन्त्रिणा मार्करूटेन साकं चर्चा विधास्यति मंत्रणोपवेशनान्तर्गतं उभयो देशयो मध्ये सामरिक सम्बन्धविषयेष् एवंच पारस्परिक सम्बन्ध स्दृढीकरणविषयेष् चर्चा सम्भाविता अथ च उभौ समकक्षीयनेतारौ जलसंसाधनव्यवस्था कृषि खादय प्रोन्नति स्वास्थ्य विज्ञान प्रोद्यौगिकी अंतरिक्ष ऊर्जा समेत्य नैकेष् विषयेष् चर्चा विधास्यत पीएम तेगबहादुर प्रधानमन्त्रिणा श्री नरेन्द्रमोदिना श्री ग्रूतेगबहादुरस्य चतृःशततमीं प्रकाशपर्व जयन्तीमभिलक्ष्य गठितोपवेशने स्वविचारा प्रकटिता तेनोक्तं यत् भारतं श्रीग्रूतेगबहाद्रस्य चत्शततम प्रकाशपर्व अवसरे श्रद्धांजलिं समर्पयिष्यति अस्मिन् उपवेशने तेनोक्तं यत् य्वजना गुरूतेगबहादुरस्य जीवनात् सम्प्रेरिता स्यु

केन्द्रेण उच्च स्तरीय समित्या गठनं गतवर्ष अक्टूबर मासस्य चतुर्विशति दिनांके कृतमासीत् अस्यां समित्यां सप्तति सदस्या सन्ति पुरीक्षा पे चर्चा प्रधानमन्त्री प्रावोचत् यत् विद्यार्थिभि अभिभावकै च परीक्षा जीतनान्तत्वेन न द्रष्टव्या अपित् सर्वदा एव उत्तमान् प्रयासान् विधायभविष्यति भद्रतरप्रदर्शनं विद्यात् प्रयतितत्यम् असौ गतसायं परीक्षा पे चर्चाइति कार्यक्रमस्य प्रथमे दृश्य श्रव्य संस्करणे शिक्षकै अभिभावकै विद्यार्थिभि साकं च तन्त्रीय संवादचिन्ताम् आपीडं च दूरी कर्त् सविस्तरं संवादम् अन्ष्ठितवान् श्रीमता मोदिना उक्तं यत् अभिभावका न कथमापि सन्ततिष् आपीडं वर्धयेय्

विगतासु चतुर्विशति होरासु प्रायशः व्रिंशल्लक्षमितानि सूच्यौषधानि जनेभ्यः प्रदत्तानि एतत्प्रकारेण भारतं विश्वस्य प्रथमो देश यत्र केवलं दवयशीति दिवसेष् एव लक्षोत्तरनवकोटिसूच्यौषधानि वितरितानि सन्ति

पश्चिम बंगाल निर्वाचनम् पश्चिम बंगाल विधानसभा निर्वाचनोपक्रमे चत्र्थचरणस्य मतदानाय निर्वाचन प्रचार अद्य सायं समाप्तो जात अस्मिन् चरणे पंचजनपदानां चतुश्चत्वारिंशत्र आसनेभ्य शनिवारे मतदानं समन्ष्ठास्यते

इति वार्ता